सप्तत्यृत्तर त्रि शतमित्यस्य विशिष्टानुच्छेद प्रभावकारणातु केन्द्रप्रशासनस्य योजनाया राज्यवासिनो वंचिता अवर्तन्त

येन जना लाभान्विता स्यु उपराष्ट्रपति उपराष्ट्रपति एम् वेंकैया नायडू ब्रूते यत् जम्मूकश्मीरस्य विशिष्ट धाराया सप्तत्यधिक त्रिशतं इत्यस्य निराकरणं नासीत् राजनैतिक लाभ सम्बद्ध प्रकरणं

वक्तव्यमिदं अम्ना विजयवाड़ा नगरे समन्ष्टिते कार्यक्रमे प्रकाशितम्

एन् आर् सी असम प्रशासनेनोदीरितं यत् अन्त्य राष्ट्रिय नागरिक पंजीकरणे एन् आर् सी इत्यस्मिन् नाम विहीना जना कथमपि नैव अधिकरिष्यन्ते तेषां भारतीय नागरिकता सम्बद्ध सत्यता परीक्षणं तु केवलं वैदेशिकाधिकरणानां निर्णयानन्तरमेव विधास्यते

अत्रान्तरे प्रियमित्राय स्वर्गीय अरूण जेटलिने प्रधानमन्त्रिणा श्रद्धांजलि समर्पित असौ गृहमन्त्रिणा अमित शाहेन सहकृतो आसीत् अवधेयमस्ति यत् गत शनिवासरे नवदिल्लीस्थे एम्स चिकित्सालये श्रीअरूणजेटली निधनम्पगतो आसीत् प्रकाश जावडक्कि भारतं भूमिं उत्पादन क्षमता समन्विते प्रकरणे संयुक्त राष्ट्र सन्धि सम्बद्ध पक्षाणां सम्मेलनस्यायोजनं करिष्यतीति निर्णीतवान् नवदिल्यामद्य विषयमम् अवलम्ब्य पर्यावरणमन्त्रिणा प्रकाश जावडेकर वर्येण वक्तव्यमिदं प्रकटितम्

स्थानीयजना येन स्वीय समूह सम्बद्ध सामाजिक विकास विषयानधिगम्य जागरूका भवन्त् अमितखरे वर्य नवदिल्ल्यां त्रिदिवसीयम् सप्तमं राष्ट्रिय सामुदायिक रेडियो सम्मेलनस्योद्घाटनिकं सत्रमद्य समुद्रोधयति स्म

एकस्मिन् ट्वीट् सन्देशे प्रधानमन्त्रिणा स्वर्णपदक विजेत्यै क्रीडिकायै देश सम्मानं समेधितुं शुभकामना प्रदत्ता